यूरोपीयसंघ कश्मीर यूरोपीय संघस्य पोलैण्ड इटली देशीयौ सांसदौ रायसजर्ड चजार्नेकी फुल्वियो मार्ट्सिएलो च कश्मीर विषयम् अधिकृत्य भारतस्य पक्षं प्रर्णतया समर्थितवन्तौ आतंकिभ्य शरण प्रदं पाकिस्तानं च कट्वालोचितवन्तौ हय य्रोपीय संसद प्र्णोपवेशने संप्रवृत्तायां विशिष्ट चर्चायां चजार्नेकी भारत देशं जगतो महत्तम लोकतन्त्रत्वेन अवर्णयत् सः अब्रतीत् यद् यूरोपीयसांसदैः जम्म् कश्मीरे द्रापादितानि आतंकवाद्याक्रमणानि अवेक्ष्यन्तमाम् न खल् तत्र आतंकिन चन्द्रग्रहात् अवतीर्णा ते स्पष्टतया भारतस्य प्रतिवेशिन पाकिस्तानादेव प्रेषिता अपर सांसद मार्ट्सिएलो यूरोपीया संसद् अचेतमत् यत्याकेन परमाण्वास्त्रप्रयोगस्य तर्जना पौनप्न्येन प्रदीयमानास्ति या हि यूरोपीय संघाय अपि महत् चिन्ताकरी विद्यते भारतम ाकिस्तानम पाकिस्तान दवारा विगते सप्ताह दवये हयो दवितीय वारं भारतस्य विशिष्ट जनेभ्यो विहितं स्वीय वैमानिक क्षेत्र प्रयोग प्रतिषेधम् अभिलक्ष्य भारतेन भ्यान् खेद प्रकाशितोऽस्ति विदेश मन्त्रालयीय प्रवक्ता रवीश क्मार अब्रवीत् यत् इस्लामाबादः स्वीय चिरन्तन प्रकृते अन्रूपम् भारतं विरुध्य एकपक्षीय पदक्षेपाणाम प्रवृतिं प्नर्विचारयेत